प्रधानमंत्रिणा श्रीनरेन्द्रमोदिना गतदिवसे भारत बांग्लादेशयोः मध्ये निर्मितस्य मैत्री सेतोः उद्घाटनं विहितम् प्रधानमंत्रिणः मुख्यसचिवेन डॉ पीके मिश्रावर्येण कोविड सुच्यौषधाभियानस्य समीक्षायै उच्चस्तरीयमंत्रणा विहिता अपि च पश्चिमबंगाल आसाम राज्ययोः प्रथम चरणीय विधानसभा निर्वाचनक्रमे नामांकनपत्राणां परीक्षणकार्यं भविष्यति अद्य

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्प स्वीकुर्वन्तु मखावरकं सन्धारयन्त सामाजिकदरता परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त्

अवधेयास्पदं वर्तत यत् गतदिवसे मुख्यमंत्रिणा त्रिवेंद्रसिंह रावतेन त्यागपत्र प्रदत्तमासीत् यच्चानन्तरं मंत्रणोपवेशने नूतनाध्यक्षोपरि चर्चा विधास्यते अस्मिन् मंत्रोपवेशने केंद्रीयपर्यवेक्षकाः भाजपादलस्य वरिष्ठनेतारश्व सम्पस्थिताः भविष्यन्ति देहरादने वार्ताहरान् सम्बोधयता श्रीमता रावतेन प्रतिपादितं यत् एषः भाजपादलस्य सामूहिकत्वेन गृहीतो निर्णयो वर्तते प्रधानमंत्री मैत्री सेत् प्रधानमंत्रिणा श्रीनरेन्द्रमोदिना गतदिवसे भारत बांग्लादेशयोः मध्ये निर्मितस्य मैत्री सेतोः उद्घाटनं विहितम् एष उद्घाटन कार्यक्रमः दृश्यश्रव्य परान्तर्जालीय माध्यमेन समनृष्ठितः त्रयस्निंशदधिक एकशतकोटि रूप्यात्मक राशि निर्मितेन अनेन सेतुना भारतस्य सबरूम क्षेत्रस्य बांग्लादेशस्य रामगढ़ क्षेत्रेण सह सम्पर्को भविष्यति प्रधानमंत्रिणा नरेन्द्रमोदिना अस्मिन् अवसरे प्रतिपादितं यत् सेतुनिर्माणेन उभयोः देशयोः मध्ये सम्बधान् दुढीकरणे आर्थिक क्षेत्रे तीव्रविकासाय च महत् साफल्यं प्राप्स्यते श्रीमता मोदिना एतदपि भणितं यत् पदन्यासेन अनेन भारते वंश अगरूवर्तिका नारिकेल अनानासफलानाम उत्पादने महती वृद्धिः भविष्यति एवञ्च अगरतला अन्ताराष्ट्रिय समुद्रीय समीपतम भारतीय नगररूपेण प्रसिद्धिः अवाप्स्यते कोविड समीक्षा प्रधानमंत्रिणः मुख्यसचिवेन डॉ पीके मिश्रावर्येण कोविड सूच्यौषधाभियानस्य समीक्षायै उच्चस्तरीयमंत्रणा विहिता अस्मिन् मंत्रणोपवेशने राज्याना केन्द्रशासितप्रदेशानाञ्च मुख्यसचिवाः समुपस्थिताः आसन् अस्मिन् अवसरे स्वास्थ्यसचिवेन प्रतिदिन विंशति लक्षमितात्मक सूच्यौषधप्रदानाथं सूच्यौषधाभियानं प्रशंसितम् साम्प्रतं यावत् देशे प्रायः पञ्चाशत् लक्षोत्तर द्विकोटि लाभार्थिनः सूच्यौषधं प्राप्नुवन्तः केन्द्रीय मंत्रिमंडल सचिवेन राजीव गोबा वर्येण सर्वेषां पात्र लाभार्थिनां कृते सूच्यौषधप्रदानाय सर्वे प्रमुखसचिवाः दिंग्निर्देशिताः

अद्य उभयोः राज्ययो नामांकन पत्राणां परीक्षण कार्यं भविष्यति नामांकन प्रत्यवाप्तये अन्तिमः दिनांकः द्वादशतारिका वर्तते

प्रधानमंत्री जापान प्रधानमंत्रिणा श्रीनरेन्द्रमोदिना भारत जापानयोः मध्ये वैश्विक सम्बन्धानां सुदृढ़ीकरणाय मैत्रीस्थापना प्रगति विषये च जापानस्य प्रधानमन्त्रिणा सुगा योशी हिल्डे वर्येण साकं मंत्रणा विहिता राष्ट्रपति राष्ट्रपतिः रामनाथ कोविन्दः अद्य तमिलनाडोः वेल्लोर प्रान्ते थिरूवल्लूर विश्वविद्यालयस्य षोडश दीक्षान्त समारोहे भागं ग्रहीष्यति निर्वाचनायोग केन्द्रीय निर्वाचनायोगेन आसाम पश्चिम बंगाल केरल पुदच्चेरी तमिलनाड़ राज्येष भावि विधानसभानिर्वाचनेष् प्रत्येकस्मै राष्ट्रियदलाय क्षेत्रीयदलाय च आकाशवाण्यां दूरदर्शने च निर्धारितसमयं द्विगुणीकरणार्थं निर्णयो गृहीतः